प्रधानमन्त्रिणा नरेन्द्रमोदिन परीक्षा योद्धा प्स्तकस्य नव संस्करणस्य विमोचनं कृतम् भारतं मैत्री इति कोरोनाप्रतिरोधी सूच्यौषधाभियानान्तर्गते फिजी नाइजर जिम्बाब्वे च देशेभ्य कोरोनाप्रतिरोधी सूच्यौषधानानि प्रेषयत् देशे साम्प्रतं यावत् स्वस्थतामिति द्वे त्रीणि दशमलवोत्तर चतुर्ण्णवतिमिता वर्तते

भवन्त अपि अस्माभि सह सुरक्षाया उपाय त्रयस्य सङ्कल्प स्वीक्वन्त् मुख आवरकं सन्धारयन्त् सामाजिक दूरतां पालयन्तु पाणि पादं च यथा समयं प्रक्षालयन्तु

आगामि दिवसेभ्य मुख्य नेतार प्रचाराय केरलराज्ये गामिष्यन्ति प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रचाराय पालक्काडे गमिष्यति अत्र प्रधानमन्त्री एकां जनसभा अपि सम्बोधविष्यति प्रधानमन्त्री अप्रैल मासस्य द्वितीय दिनांके पाथानन्थीतायां तिरुवनन्तप्रमनगरे च गमिष्यति केन्द्रीय मन्त्री अमित शाह गिरिराज सिंह भाजपा दलस्य राष्ट्रीय अध्यक्ष जेपीनड्डा च एनडीए इति राष्ट्रीय जनतांत्रिक संयुत्यै प्रचार करिष्यन्ति कांग्रेस नेता प्रियंका गांधी अपि अद्य केरले यूडीएफ इति संयुत्यै प्रचार करिष्यति विधानसभा चनाव असमे पश्चिम बंगाले च द्वितीय चरणार्थं नैर्वाचनिक प्रचार तीव्रगत्या प्रचलति पश्चिम बंगाले द्वितीय चरणस्य मतदानं अप्रैल मासस्य प्रथमे दिनांके भविष्यति येषु विधानसभा क्षेत्रेषु न केवलं नन्दीप्राम अपितु खड़गपुर सदर एवञ्च मोयना अपि प्रमुख निर्वाचनक्षेत्रम् अस्ति अद्य असमे नैर्वाचनिक प्रचारार्थं अन्तिम दिवस वर्तते अस्मिन् चरणे निर्वाचनाय नवत्रिंशत् आसनेष् पञ्चचत्वारिंशदधिक त्रिशतं प्रत्याशिन सन्ति

मोदिन पुस्तकस्य नूतन संस्करणं इदानीं छात्रेभ्य अभिभावकेभ्य च प्रकाशितं वर्तते मोदिना ट्वीट्माध्यमेन कथितं यत् अस्य पुस्तकस्य नूतन संस्करणे छात्रेभ्य अभिभावकेभ्य शिक्षकेभ्यश्च मूल्यावहा शिक्षावर्तन्ते

एतानि सूच्यौषधानि ह्यः फिजीदेशं सम्प्रापितानि

एतदर्थ बैनीरामा प्रधानमन्त्रिणे मोदिने कार्तज्ञ प्राकटयत् भारतेन अध्ना पर्यन्तं सप्तत्यधिक देशेष् अस्मिन् अभियानान्तर्गते कोरोनाप्रतिरोधी सूच्यौषधंप्रेषितम् कोविड देशे साम्प्रतं यावत् त्रिंशत सहस्राधिक पञ्चलक्षोत्तर षड्कोटि जना कोरोना सूच्यौषधं प्राप्तवन्त